प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य कतिपय देशानां प्रमुखैस्साकं मन्त्रयिष्यति अस्य ईरान राष्ट्रपतिना हसन रूहानिना साइप्रस राष्ट्रपतिना निकोस अनास्तासियादिस इत्यमुना च साकं मेलनस्य कार्यक्रमोऽपि वर्तते श्रीमोदिना गतरात्रावपि न्यूयॉर्के संयुक्तराष्ट्र महासभाया चतुस्सप्तति तमादधिवेशनात् पृथक् बेल्जियम न्यूजीलैंड अर्मीनिया देशानां प्रधानमन्त्रिभि एस्टोनिया देशस्य राष्ट्रपतिना च सार्ध दवैपाक्षिकान्युपवेशनानि समन्ष्ठितानि आसन्

न्यूयॉर्के हय कतिचित् कार्यकार्यधिकारिणां सम्पवेशने प्रधानमन्त्रिणा ते समन्रोधिता यत्ते समेऽपि भारतस्य विकास यात्रायां सहभागिनो भवन्तु एतै अधिकारिभिः भारते निवेशस्यावसरेभ्यो रूचिरपि प्रदर्शिता उदयोगसंवर्धन आन्तरिक वाणिज्य विभागस्य सचिव ग्रूप्रसाद महापात्रा प्रत्यपादयत् यत् उपवेशने सूचना प्रौद्योगिकीय खाद्यप्रसंस्करण ऊर्जा रक्षा सन्निभानां क्षेत्राणां प्रमुखा समवाया सम्मेलिता आसन् राष्ट्रपति संगोष्ठी राष्ट्रपति श्रीरामनाथकोविन्द अद्य नवदिल्ल्यां मानवता सामाजिकोन्नतये अध्यात्मम् इति विषयिणीं राष्ट्रियां संगोष्ठीं समृदघाटयत् राष्ट्रपतिना प्रतिपादितं यत् सत्याहिंसयो महात्मा गान्धिनो दर्शनं समग्र विश्वाय लाभप्रदमस्ति

उपराष्ट्रपति देशस्य ऐतिहासिक स्थलानां संरक्षणमुददिश्य योगदानाय देशवासिन समाहवयत् उपराष्ट्रपति एम् वेंकैया नायड्

राज्यस्यास्य दवितीययात्राया उद्देश्य राज्यस्य सीमावर्तिक्षेत्राणाश्व सुरक्षास्थिति समीक्षणं वर्तते प्रधानमन्त्री मनमोहनसिंह प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना कांप्रेसनेता पूर्व प्रधानमन्त्री च डॉक्टर मनमोहनसिंह तज्जन्मदिवसोपलक्ष्ये वर्धापित तस्य सुस्वास्थ्यस्य दीर्घायुष्यस्य च कामना कृता डॉ मनमोहनसिंह सप्ताशीतिवर्षीयो जात

तालिबानातांकि ग्रुल्मेन मतदानावसरे मतदानकेन्द्रेष् आक्रमणस्य तर्जना प्रदत्तास्ति यदयिप निर्वाचनेऽस्मिन् अष्टादश प्रत्याशिनो निर्वाचनसमरे अवतीर्णा सन्ति

स्पर्धेयम् अद्य सायं सप्तवादनात् समारप्स्यते